प्रशासनेन प्रतिपाद्यते यद् विगते वर्षपञ्चके प्रधानमन्त्रि वृति सृजन कार्यक्रमान्तर्गतं सूक्ष्म लघ् मध्यमोद्यम क्षेत्रेष् विंशति लक्षाधिका वृत्तेरवसरा संसुजिता केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्री डॉक्टर हर्षवर्धन समेधमानां जनसंख्यां बृहच्चिन्तात्वेन प्रत्यपादयत्

शीर्षन्यायालय कर्णाटकम सर्वोच्च न्यायालयेन कर्णाटकस्य दश विद्रोहि विधायका समादिष्टा यते अद्य सायं यावत् विधानसभाध्यक्षं सम्मेल्य त्यागपत्रस्य निर्णयस्य संज्ञानबोधं कारयेय् प्रधानन्यायाधीशस्य न्यायमूर्ते रञ्जनगोगोई इत्यस्य आध्यक्ष्य य्तेन पीठेन विधानसभाध्यक्ष विनिर्दिष्टो यत् स त्यागपत्रविषये अद्यैव विनिर्णयेत्

पीठेन अध्यक्ष अध्यर्थितो यत् स श्व पर्यन्तं नैजं निर्णयं नूनमेव संसूचयेत् वरिष्ठ अधिवक्ता म्क्ल रोहतगी प्रत्यपादयत् यत् न्यायालयेन एतेभ्य विधायकेभ्य मुम्बईत बेंगलौर गमन पर्यन्तं सुरक्षाप्रदानमपि सन्निर्दिष्टम् अस्ति शीर्ष न्यायालयेन इदमपि स्पष्टीकृतम् यदयं निर्णय केवलं दश विधायकेभ्य एव वर्तते अत्रान्तरे कर्णाटकस्य म्ख्यमन्त्रिणा एचडीक्मारस्वामिना निगदितं यत् स स्वपदत्यागं नैव करिष्यति कांग्रेस वरिष्ठनेतृभि सह मेलनानन्तरम् अद्य बेंगलूरौ पत्रकारै समं सम्भाषणावसरे अमुना प्रबलं प्रतिपादितं यत् तस्य पार्श्वे स्पष्ट बह्मतस्ति

सूक्ष्म लघु मध्यमोद्यम मन्त्री नितिन गडकरी लोकसभायाम् एकस्मिन् लिखितोत्तरे सर्वमेतत् प्रत्यपादयत्

विश्व जनसंख्या दिवसावसरे अद्य नवदिल्ल्यां कार्यशालामेकाम्द्घाटयता अम्ना भणितं यत् समेधमाना जनसंख्या चिन्ताकरी वर्तते